मेक्सिकोशासनेन अमेरिकायाम् अवैधरीत्या प्रवेष्ट् प्रयासरताः एकादशाधिक त्रिशतसंख्यकाः भारतीयाः निर्वासिताः

पीयूषआन्तर्जालिकवाणिज्यम् केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः प्रावोचत् यत् प्रशासनं वालमार्ट् समवायस्य स्वामित्वाधीनयोः फिलप्कार्ट् अमेजॉन् समवाययोः तथाकथितं परापकर्षि आन्तर्जालिक वाणिज्य मूल्यम् अधिकृत्य अन्वीक्षणारतं विद्यते ह्यो मुम्बय्यां वार्ताहैरः संभाषण क्रमे श्रीगोयलः व्यज्ञापयत् यदेताभ्यां समवायाभ्याम् उक्तारोप प्रसंगे काचित् प्रश्नावली प्रशासन पक्षतः प्रेषिताऽस्ति सम्प्रति तत्पक्षतस्तद्तरं च प्रतीक्ष्यते विधानसभानिर्वाचनानि महाराष्ट्रे हरियाणायां च भावि विधानसभा निर्वाचनार्थं राजनैतिक वृन्दानां प्रचाराभियानानि सम्प्रति अन्तिमचरणं प्राविशत् तेषां नैर्वाचनिक प्रचारोऽयं परश्वः पर्यन्तं प्रचलिता

उक्त वीथीमधिकृत्य जनसंचारीय जनानां प्रश्नजातमुत्तरन् विदेश मन्त्रालयीयः प्रवक्ता रवीश कुमारः असुचयत् यत् पाकिस्तानं प्रत्येक तीर्थयात्रिणि विंशति डॉलर मुद्राणा सेवाशुल्कमारोपथित ं दराग्रह परं दृश्यते